केन्द्रशासितप्रदेशस्य समग्र विकासाय प्रशासनेन प्रवर्तितेषु विकास योजना विषयेषु जना ज्ञापयिष्यन्ते राष्ट्रियान्वेषणाभिकरणेनाद्य जम्मूकश्मीरस्य आरक्षि उपाधीक्षकस्य देवेन्द्ररसिंहस्य विरोधे प्रकरण पञ्जीकारितम् असमे मन्त्रिमण्डलस्य विस्तारोभत मन्त्रिमण्डले नृतन सदस्य द्वयस्य समावेश रोम रैंकिंग सीरीज़ इति प्रतिस्पर्धाया निर्णायक द्वन्द्वे विनेश फोगा स्वर्णपदकं विजित्य इतिहासम् अरचयत्

जम्म् यात्रा प्रधानमन्त्रि कार्यालये नियुक्तं राज्यमन्त्रिणं डॉ जितेन्द्रसिंहं समेत्य त्रय केन्द्रीय मन्त्रिण अद्य श्रीनगरं प्राप्तवन्त ध्येयमस्ति यत् षा त्रिशत्केन्द्रीय मन्त्रिणां शिष् मिण्डलम् एकम अद्य प्रभृति जम्मुकश्मीरस्य अधिकारिक यात्रायै प्रस्थास्यति इति सुनिश्चितमासीत् राज्ये प्रतिकूल ऋत् प्रभावात् तेष् एव ष् प्रिंशत्केन्द्रीय मन्त्रिष् उपरोक्ता त्रय मन्त्रिण सम्प्रति तत्र श्रीनगरं प्राप्तवन्त सप्ताहव्यापिन्यै यात्रायै गम्यमानेन ष प्रिंशत् केन्द्रीय मन्त्रिमण्डल युतेन शिष्ट्रिण्डलेन केन्द्रशासित प्रदेशस्य जम्मुकश्मीरस्य विविधेष् षष्टि क्षेत्रेष् यास्यन्ति यत्र मन्त्रिभि राज्यस्य समग्र विकासाय प्रशासनेन प्रवर्तितेष् विकास योजना विषयेष् जना ज्ञापथिष्यन्ते जम्मूकश्मीरस्य विशिष्ठ रेतर प्रदायकस्य अनुच्छेदस्य अपसारणानन्तरं जम्मुकश्मीरराज्यं केन्द्रशासित प्रदेशत्वेन प्रतिष्ठापितांगतम् तत्र विगतेभ्य पञ्चमासेभ्य केन्द्रप्रशासनेन जनहिताय नैका योजना प्रवर्तिता जनेष् एतासां योजनानां लाभ प्रसारणमुद्दिश्य यात्रेयं निर्धारितास्ति तत्रैव नूतनत्वेन प्रतिष्ठापितांगते केन्द्रशासित प्रदेशे जम्मूकश्मीर अद्य प्रभृति समारब्धा पूर्व दत्त श्ल्क चलभाष सेवा ऑगस्त मासात् अवरूद्व अन्तर्जाल सौविध्यं चापि उपत्यकाया द्वयो क्षेत्रयो प्रवर्तितम्

एन आई ए राष्ट्रियान्वेषणाभिकरणेनाद्य जम्मूकश्मीरस्य आरक्षि उपाधीक्षकस्य देवेन्द्ररसिंहस्य विरोधे प्रकरणं पञ्जीकारितम् असौ सद्य एव त्रिभि आतंकिभि कश्मीर निगडित आसीत् गृहमन्त्रालयस्व निर्देशानन्तरं अभिकरणेन तं विरूद्वय कार्याचरणमिदं प्रवर्तितम् प्रकरणस्य सम्प्रति अन्वेषणं प्रचलति असमम् असमे मुख्यमन्त्रिण सर्बानन्दसोनोवालस्य नेतृत्वयुतस्य मन्त्रिमण्डलस्य विस्तारोभूत् मन्त्रिमण्डले नृतन सदस्य द्वयेनाद्य प्रतिज्ञावचनानि प्रतिश्त्तानि मन्त्रिभ्य प्रदीयमानानां विभागानां समुद्घोषणापि अधैव विधास्यते विनेश स्वर्णपदकम् रोम रैंकिंग सीरीज़ इति रोम मानांकन मल्लयुद्ध प्रतिस्पर्धा श्रृंखलाया त्रि पञ्चाशत् किलोप्राम भारवर्गीये निर्णायक द्वन्द्वे विनेश फोगा स्वर्णपदकं विजित्य इतिहासम् अरचयत् तत्रैव श्रृंखलाया सप्तपञ्चाशत् किलोप्राम भारवर्गे भारतीया युवा क्रीडिका अंशु मलिक स्वर्णपदकम् अवाप्तवती टेनिस् ऑस्ट्रेलियाया होबा िगरे समनुष्ठितया महिलायुगलस्य अन्ताराष्ट्रिय प्रिस् र्जिमेन इति प्रितस्पर्धाया निर्णायक द्वन्द्वं भारतस्य सानियामिर्ज़ा यूक्रेनस्य नादिया किचेनोक इत्यनयो युगलेन विजितम्